एकतादिवस देश अद्य सरदार वल्लभ भाई पटेलस्य चतुश्चत्वारिशदुत्तैकशत तमं जन्म जयन्योत्सवं राष्ट्रियैकता दिवसत्वेन परिपालयति अत्रावसरे प्रधानमन्त्री नरेन्द्रमोदी ग्जराते केवडिया स्थितायां स्टेच्यू ऑफ यूनिटी नामाधारितायां सरदार पटेलस्य जगतो विशालतमायों प्रतिमायों पुष्पांजलिं समार्षयत अनन्तर्र प्रधानमन्त्रिणा प्रतिमा परिसरे समुपस्थित जनसागर राष्ट्रियैकताया प्रतिज्ञावचनेन प्रतिज्ञापित अत्रावसरे गुजरातारक्षिबलै केन्द्रीय सैन्यबलैश्च समायोजिता राष्ट्रियैकता दिवस सैन्ययात्रापि अम्ना नयनगोचरी कृता स्वीयोद्रोधनकाले श्रीमोदी भारतस्य एकतायै पटेलस्य महत्त्वाधायिनं योगदानं संस्मरन् प्रावोचत् यत् सप्तत्यधिक त्रिशत संख्याकस्य अनुच्छेदस्यापसारणानन्तरं पटेलस्य स्वप्नं साक्षाद्वतम् भारतस्य पूर्णरूपेण एकीकरण स्वप्नं हि पटेलस्य तथोक्तान्च्छेद प्रवर्तन वशात नैव पूर्णतां गतमासीत जम्मुकश्मीर राजनैतिक स्थिरतायै तन्निवासिभि जायमानाय भेदभावोन्मूलनाय च प्रशासनस्य प्रतिबद्धता प्रधानमन्त्रिणा सविशेषमूदीरिता

गहमन्त्री गृहमन्त्री अमितशाहो न्यगादीद यत् सप्तत्युत्तर त्रिशत संख्याक अनुच्छेद पंचत्रिंशत् ए त्रि धारा चापि आतंकवादिना कृते द्वारद्वयमवर्तत तथोक्त द्वार द्वयोरपवारण प्रस्सरे पटेलस्य भारतैकीकरण स्वप्न प्रपूरित प्रधानमन्त्रिणा

ति पूर्व राष्ट्रपतिना गृहमन्त्रिणा दिल्या उपराज्यपालेन नागर आवासमन्त्रिणा चापि राजधान्यां सरदारपटेलस्य प्रतिमायाम् श्रद्धासुमनांसि समर्पितानि

मुम्बय्यां शिवसेनाभवने दलाध्यक्षस्य उद्धव ठाकरे वर्यस्य समक्षं दलस्य नवनिर्वाचितै विधायकै असौ दल विधायक नेतृपदाय स्वीकृत

लेहस्थे सिन्ध् संस्कृत केन्द्रे लद्दाखस्य उपराज्यपालत्वेन राधाकृष्ण माथुरः शपथं अग्रहीत् असौ जम्मू कश्मीरोच्चन्यायालस्य मुख्य न्यायाधीशया गीता मित्तलेन पदगोपनीयतायै शपथं कारितवान् प्रसारभारती प्रसारभारत्या मुख्य कार्यकार्यधिकारी शशि शेखर वेम्पति अद्य नृतन केन्द्र शासित प्रदेशयो जम्मुकश्मीर लद्दाखयोश्च संचालितानाम् आकाशवाणी स्थात्राणां नाम प्ररिवर्तनोद्वोषणा विहिता